जम्मू कश्मीरे केन्द्रशासित प्रदेश गतनिशिथात् द्रभाष संदेश प्रेषण सेवा अन्त र्जाल सेवा प्नरारब्धा

सम्पूर्णे जगति अद्य विंशत्य्त्तर द्विसहस्रतमस्य ईस्वीयवर्षस्य अभिनन्दनं विधीयते

मूलभूतक्षेत्रे निवेशमेधित् प्रशासनस्य प्रयासासनां सोपानेष् इमा परियोजना आगामिष् पञ्चवर्षेष् प्रयिष्यन्ते

जम्मू कश्मीर प्रशासनस्य प्रवक्त्रा रोहित कंसलेन जम्म् क्षेत्रे सूचितं यत् जम्म् कश्मीरस्य सर्वेष् चिकित्सालयेष् आन्तर्जालीय सेवा अपि अदय प्न प्रारप्स्यन्ते

राष्ट्रिय अन्वेषण अभिकरणस्यन्सारेण आक्रमणमिंद चन्देल जनपदस्य चमौल साजिर तम्पार्क मार्गस्य उदघाटन समारोहे सञ्जातम् चन्द्रयानं तृतीयम् प्रधानमन्त्री कार्यालये राज्यमन्त्री डॉ जितेन्द्रसिंह प्रत्यपादयत् यत् भारतं विंशत्य्त्तर द्विसहस्रतमे वर्षे चन्द्रयानं तृतीयस्य प्रक्षेपणं विधास्यति विगते अहनि नवदिल्ल्यां वार्ताहरान् सम्बोधयन् जितेन्द्रसिंह प्रावोचत् यत् चन्द्रयानं तृतीयस्य प्रक्षेपणे चन्द्रयानं द्वितीयापेक्षया अल्पो व्ययो भविष्यति इसरो इति भारतीयान्तरिक्षानुसन्धानसंघटनं चन्द्रयान तृतीयस्य दक्षिणध्रवात् प्रक्षेपणयोजनां निर्माति रविशंकरप्रसाद केन्द्रीयो विधिमन्द्री रविशंकरप्रसादो ब्रूते यत् नागरिकता संशोधनविधि सम्पूर्णराष्ट्रस्य ऐक्याय विधिसम्मतः सर्वग्णोपेतश्च वर्तते केरल विधानसभायाम् एतद् समबद्धविधेयकस्य प्रस्त्तेरनन्तरम् विधिमन्त्री प्रावोचत् यत् नागरिकताविधौ संशोधन परिष्कारशक्ति केन्द्र प्रशासनस्य पार्श्वे विद्यते न तु विधानसभाया सविधे निगदितं च यत् नागरिकतासंशोधनविधि देशस्य नागरिकाणां विरुद्धं नास्ति अपित् विधिरयं पाकिस्तान बाड्ग्लादेश अ गानिस्तान राष्ट्राणाम् अल्पसंख्यकसम्दायै सम्बद्ध अस्ति

अत्रावसरे राष्ट्रपत्य्प राष्ट्रपति प्रधान मन्त्रिभि समेभ्यो देशवासिभ्यो विंशत्युत्तर द्विसहस्रतमवर्षस्य श्भकामना व्याहृता राष्ट्रपति रामनाथकोविन्दः प्रावोचत् यत् अस्मिन् वर्षे सर्वेरपि समाजे शान्तिसन्धारणाय नवप्रकल्पा विधातव्या